पंचमाय चरमाय च चरणाय नैर्वाचनिक प्रचाराभियानानि सम्प्रति तीव्रतां भजन्ति

झारखंडम् निर्वाचनानि झारखंडे विधानसभा निर्वाचनानां चतुर्थ चरणे ह्य प्रायश द्विषष्ट्या प्रतिशतं जनै स्वीय मताधिकार प्रयुक्त मतदानानि सर्वत पूर्णतया शान्तिपूर्णानि अवर्तन्त अत्रान्तरे राज्ये पंचमाय चरमाय च चरणाय नैर्वाचनिक प्रचाराभियानानि सम्प्रति तीव्रतां भजन्ति

तेनोदीरितंयत् सद्योविहिन परिवर्तन सूक्ष्म लघ् मध्यमोद्यमिन न्यूनीकृत कुसीद मूल्येष् ऋणं प्राप्त स्वीयाम् उत्पादकतां प्रवर्धयित् प्रभविष्यन्ति

ट्वीट संदेश माध्यमेन असमस्य वित्तमन्त्रिणा हिमन्त बिस्वा सरमा कर्येण प्रोक्तं यत् अद्य प्रभृति द्रसंचार सेवा अयि पुन प्रवर्तयिस्यन्ते तत प्राक् गुवाहाट्यां वार्ताहरै भाषणाण असौ अवादीत् यत् नागरिकता संशोधन विधेयकमभिलक्ष्य विरोध प्रदर्शनानन्तरं राज्ये स्थिति साम्प्रतं शनै शनै सामान्यत्वं भजते

पाद कन्दक सप्तदश वर्ष पर्यन्त वयस्कानां किशोरीणां कृते अद्य मुम्बय्यामायोज्ये पादकन्द्व द्वन्द्वे भारत थाईलैंड संमुखी कुरुते भारतीय दलस्य कृते अद्यतनी स्पर्धेयम् अवश्य जेतव्या अस्ति